विगत दशक द्वये अयं प्रथमावसर यदा उभयो देशयो नेतारौ सम्मेलनं सामचारितवन्तौ नेताराव्भौ कोविडमहामार्या अनन्तरं विश्वे भारत लग्ज़मबर्गयो सहयोगं वर्धयित् द्विपक्षीय सम्बन्धेष् विचारादान प्रदानं विहितन्तौ

सम्मेलनं सम्बोधयन् प्रधानमन्त्री अवादीत यत् भारतं लम्ज़मबर्गम् च अन्तरा आर्थिक गतिविधीनां संवर्धन दिशि महत् सम्भावना सन्ति विधीयमाना तेनोक्तं नैकेष् क्षेत्रेष् देशद्वयं सम्भूय कार्यमाचरते परं वर्तन्ते साम्प्रतमपि एतत्क्षेत्रेष् उत्कर्षसम्भावना कोरोणाकालस्य द्रदृतया सम्मुखीकर्वन् लम्ज़मबर्ग प्रधानमन्त्री श्रीमता नरेन्द्र मोदिना अनृशंसित विदेश मन्त्रालये पश्चिम यूरोपीय प्रकरणाना संयुक्त सचिव संन्दीप चक्रवर्ती आन्त लिक माध्यमेन वार्ताहर सम्मेलने प्रोक्तवान् यत् उपवेशनमिद द्विपाक्षिक सम्बन्धाना रचनात्मकेष् कार्येष् केन्द्रितम् आसीत् उपवेशने वित्तीय क्षेत्र वित्तीय प्रविधौ हरित वित्ते अन्तरिक सम्पुटके च विशेषं बलं प्रदत्तम्